भारतॉस्ट्रेलिया जापानामेरिका देशानां नेतृणां शिखर सम्मेलनं दृश्य श्रव्य संचार माध्यमेन अद्यप्रभृति प्रारभते केरल तमिलनाडु पुद्च्चेरिषु सम्पत्स्यमानानाम् एक चरणात्मक निर्वाचनानां कृते नामाङ्कनपत्र प्रपूर्ति प्रक्रिया समारब्धा अपि चान्ते भारतेंग्लैण्डयोर्मध्ये विंशति क्षेप चक्रीय क्रिकेट् स्पर्धा मालिकायाः प्रथमं द्वन्द्वम् अद्य अहमदाबादे नोन्द्र मोदि क्रीडाङ्गणे आयोज्यते

भवन्तोऽपि अस्माभि सह सुरक्षाया उपायत्रयस्य सड्कल्पं स्वीकुर्वन्तु मुखावरकं सन्धारयन्तु सामाजिकद्रतां परिपालयन्त् पाणिपादं च यथासमयं प्रक्षालयन्त्

अयम् अमृत महोत्सव भारतस्य स्वतन्त्रताया पञ्च सप्तति वर्षपूर्तिम् अभिलक्ष्य आयोज्यते अयं हि जनोत्सवरूपेण आमानयिष्यते अत्र एकाशीति पदयात्रिण साबरमत्याश्रमात् नवसार्या दाण्डी पर्यन्तं पदयात्रां करिष्यन्ति संस्कृति पर्यटन मन्त्री प्रह्नाद पटेल पदयात्राया प्रथम चरणस्य शभारम्भं करिष्यति असौ नाडियाड पर्यन्तं पदयात्राया नेतृत्वमपि करिष्यति श्रीमता पटेलेन उक्तं यत् अमृत महोत्सवावधौ अशेष देशे नैकविधा कार्यक्रमा आयोजयिष्यन्ते अत्रावसरे प्रधानमन्त्रिणा नरेन्द्र मोदिना नैके सांस्कृतिक कार्यक्रमा प्राविधिकोपक्रमा च उद्घाटविष्यन्ते साबरमत्याश्रमे एकां जनसभामपि प्रधानमन्त्री संबोधयिष्यति

श्रीमता मोदिना स्वामिन चिद्धवानन्दस्य भगवद्गीताया किंडल् इति आन्तर्जालिक संस्करणस्य विमोचन समारोहे एवमभिभाषितम् तेनोक्तं यत कोविड़ नवदश महामार्या दष्प्रभावेन जना चिन्तिता आसन परं च भारतीय वैज्ञानिकै सुचयौषधं निर्मितम यद हि गौरवस्य विषयो वर्तते

गीताया मूलसन्देश कर्म एव अस्ति अद्यत्वे समाजे ई पुस्तकानि युवस् लोकप्रियानि इति तेन निष्पादितम् प्रधानमन्त्री प्रोक्तवान् यत् इदम् ई संस्करणम् शाश्वतगीता गौरवशालितमिलसंस्कृत्यो मध्ये सम्पर्कमपि सबलं करिष्यति

क्रिकेट् भारतेंग्लैण्डयोर्मध्ये विंशति क्षेप चक्रीय क्रिकेट् स्पर्धा मालिकाया प्रथमं द्वन्द्वम् अद्य न अहमदाबादे नोन्द्र मोदि क्रीडाङ्गणे आयोज्यते